प्रधानमन्त्री श्रीनरेन्द्र मोदी श्वः अमेरिकायाः सप्ताह व्यापिनीं यात्रां समारभते भारतीय रिजर्व बैंकस्याध्यक्षः शक्ति कान्त दासो ब्रूते यत् सउदी अरबिया संकटेन सद्यः प्रवर्धितम् अपरिष्कृत तैल मूल्यम् अनुसृत्य देशस्य मुद्रास्फीतौ सीमित एव प्रभावः संभाव्यते

संयुक्तराष्ट्रिय मानवाधिकार परिषदि तेन भारतं विरुध्य ह्यः उपस्थापितः मानवाधिकारोल्लंघन प्रस्तावः नैकेनापि सदस्य देशेन समर्थितः सन् संयुक्तराष्ट्र परिषदा निराकृतः प्रधानमन्त्री अमेरिकायात्रा प्रधानमन्त्री श्रीनरेन्द्र मोदी श्वः अमेरिकायाः सप्ताह व्यापिनीं यात्रां समारभते यात्रायामेतस्याम् आदौ श्रीमोदिनः ह्यस्टने न्यूयॉर्के च विभिन्नाः कार्यक्रमाः निर्धारिताः सन्ति सः यात्रान्ते सप्तविंशे दिनांके संयुक्तराष्ट्रपरिषदो महासभां सम्बोधयिष्यति ह्यो नवदिल्ल्यां प्रधामन्त्रिणो यात्रासारं विवृण्वन् विदेश सचिवः विजय गोखले व्याहरत् यत् श्रीमोदी तत्र ह्यस्टन् नगरे आगामिनि रवि वासरे भारतीय समुदायं समुद्रोधयिष्यति अवसरेऽस्मिन् अमेरिकियो राष्ट्रपतिः डॉनल्ड ट्रम्पश्चापि तेन सहयोक्ष्यति मंगलवासरे भारतं संयुक्तराष्ट्रपरिषदि महात्मागांन्धिनः सार्ध शत वर्ष पूर्त्यवसरे विशिष्ट कार्यक्रममेकं समायोजयिष्यति

ध्यातव्यमस्ति यत् सउदी अरबियाया जगतो महत्तमे तैल परिष्करण संयन्त्रे ड्रोनाक्रमण कारणात् तैलमूल्ये प्रतिशतं विंशति मिता वृद्धिः संजाताऽस्ति केन्द्रीयान्वीक्षणाभिकरणम् केन्द्रीयाऽन्वीक्षणाऽभिकरणेन आईएम्ए प्रि लघ्निवेशोद्योग प्रवञ्चना प्रकरणे कर्णाटकस्य प्राक्तनो मन्त्री ज़मीर अहमद खानः परिपृष्टोऽस्ति

आन्धप्रदेश नौकादर्घटना आन्ध्रप्रदेशो पूर्वीय गोदावरी जनपद स्थे देवीपत्तने गोदावरी नद्यां विगत रविवासरे द्रापन्नायां नौका निमज्जन द्र्घटनायां मृतकानां संख्या समेध्य चत्स्विंशत् संवृत्तास्ति निमग्न नौकायां सप्तत्यधिकाः जनाः आरूढाः आसन्

बैडमिण्टन् चीन मुक्त बैडमिण्टन् स्पर्धा मालिकायां पुरुषैकल वर्गीये प्राग्पान्त्य चक्रे अद्य बीसाईं प्रणीतः जिडोनेशिया देशीयेन प्रतिद्वन्द्विना एन्थोनी सिनिस्का गिंटिगेन सार्थं स्पर्धिष्यते सम्प्रति स्पर्धा मालिकायामस्यां प्रणीतः एक एव अवशिष्टो भारतीय क्रीडको विद्यते